केन्द्रीय मन्त्रिमण्डलम् वैदयूदीय धूम्रवर्तिकाया दृष्प्रभावं निधाय सर्वतोभावेन प्रतिबन्धकर अध्यादेश अदय केन्द्रीय मन्त्रिमण्डलेनान्मोदितः

अध्यादेशान्सारि प्रथमं नान्पालयन्तो जना एकवर्षात्मक कारावासदण्डभागिनो अथ लक्षैकरूप्यकाणां दण्डेन दण्डयिष्यन्ते एतदतिरिच्य रेलवे कर्मचारिभ्य अष्टसप्ततिदिनानाम अधिलाभांश प्रदानमपि केन्द्रीयमन्द्रिमण्डलेन अन्मतम निर्णयेन सार्धैकादश लक्ष कर्मचारिणो लाभान्विता भविष्यन्ति अयोध्या उच्चतमन्यायालयेन प्रोक्तम े यत े राम जन्म भुमि बाबरी मस्जिद भुमि विवाद प्रकरणे समाधानं पक्षदवयम परस्परं मन्त्रणां विधाय कर्तम शक्नोति न्यायालयेन प्रोक्तम यत अस्मिन प्रकरणे वादश्रवणं प्रतिदिनं भवेत एतदर्थ अस्य वर्षस्य अक्टूबरमासस्य अष्टादश दिनांकं यावत प्रत्यहनि वादश्रवणम आवश्यकं वर्तते प्रधानन्यायाधीशस्य रंजनगोगोईवर्यस्य अध्यक्षतायां पंच न्यायाधीशानां संविधान पीठेन प्रोक्तम यत अस्य प्रकरणस्य वादश्रवणं अंतिमे चरणे वर्तते अतः वादश्रवणं प्रक्रिया प्रतिदिनं भविष्यति

गृहमन्त्री झारखण्डस्य जामताड़ा स्थले जोहार जन आशीर्वाद यात्रावसरे जनसभा सम्बोधयति स्म अग्रिम निर्वाचने भाजपादलं विजयित् मतदानाय अम्ना जना अध्यर्थिता जम्मूकश्मीरे निर्वाचनम् जम्मुकश्मीरे प्रखण्ड विकास परिषद निर्वाचनमालक्ष्य सर्वाविध सज्जा आक्तूबर मासस्य अन्त्यदिनं प्रभृति प्रप्रयिष्यन्ते कश्मीर जम्मू लद्दाखस्य उपाय्क्तैः समं समाचरितोपवेशनानंतरं म्ख्यसचिवेन बी वी आर स्ब्रह्मण्यम वर्येण सूचनेयं प्रख्यापिता एस् जयशंकर विदेशमन्त्री एस ाजयशंकर त्रिदिवसीय आधिकारिक यात्रा प्रसंगे श्व फिनलैण्डं प्रस्थास्यति विदेशमन्त्रिपदभारं सम्भलनानन्तरं फिनलैण्डेस्य प्रथमेयं यात्रा वर्तते विदेशमन्त्रिण अत्रान्तरे असौ देशयो सम्बनधं दृढयित् फिनलैण्डस्य राष्ट्रपतिं प्रधानमन्त्रिणं च मेलिष्यति मल्लयुद्धम् सुप्रसिदध मल्लय्दध क्रीडकस्य विनेश फोगाटस्य विंशत्यधिकदवि सहस्रतमवर्षीयार्थ येकियो ओलम्पिक क्रीडार्थ चयनं अभवत कजाकिस्तानस्य नूर स्ल्तानस्थले आयोजित विश्व चैम्पियन स्पर्धायां अमरीकाया रजत पदक विजेता सारा हिल्डे ब्रांट अमुना अष्टं द्वौ इत्यांतरालेन पराभूत जम्मू कश्मीरम् जम्मू कश्मीर नैशनल कांफ्रेंस इति दलेन पूर्व म्ख्यमंत्री फारूख अब्दल्लाया जनस्रक्षाधिनियमान्सारं बन्धनादेश विनिन्दित निग्रहणमिदं दलेन देशस्य जनतांत्रिक मूल्यानां आदर्शानां च विरूद्धं प्रोदीरितम उत्तरप्रदेश उत्तरप्रदेशस्य विभिन्न भागेष् वृष्ट्याधिक्येन जलौघस्थितः संजातास्ति राज्यम्ख्यमन्त्रिणा योगी आदित्यनाथेन द्वादशहोरास् द्ष्प्रभावितानां साहायोद्धाराय अधिकारिण निर्दिष्टा